प्रधानमन्त्री स लं अकथयत् यत् कोरोना विषाणो प्रकोपस्य द्वितीयं चरणं समेधते नूतन प्रकरणानां अन्वीक्षणाय आवश्यका पदक्षेपा उत्थापनीया देशे साम्प्रतं यावत् सार्ध त्रि कोटि जनेभ्य कोरोना सूच्यौषधानि प्रदत्तानि असमे विधानसभा निर्वाचनस्य प्रथमचरणाय प्रचाराभियानं सजवं प्रवर्तते भारत ांग्लादेशौ जलसंसाधनक्षेत्रेष् सहयोगवर्धनाय सहमतौ जातौ महिलाक्रिकेट प्रतियोगितायां दक्षिण अफ्रीकादलेन भारतीय दलं पराजितम्

भवन्तोऽपि अस्माभि सह स्रक्षाया उपायत्रयस्य सङ्कल्पं स्वीक्वन्त् मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त् प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी अब्रवीत् यत् कोरोना महामार्या अनन्तरं नवाचारस्य वैश्विक तन्त्र प्रणाले आवश्यकता अस्ति श्रीमान् मोदी अद्य अपराहणे अन्ताराष्ट्रिय सम्मेलनं सम्मोधयति स्म सम्मेलनस्य विषय आपदात पुन यथास्थितिं प्राप्तुं आधारभूत संरचना इति आसीत् प्रधानमन्त्री सविशेषं न्यगादीत् यत् महामारिकाल अस्मभ्यं सन्देशं प्रादात् यत् वयं सर्वेऽपि परस्परं निर्भरा स्म सकलमपि जगत् अस्ति अन्योन्याश्रितम् न त् कश्चन निर्धन देश नैव च धनिक प्रत्य्त पूर्वतः पश्चिमं यावत् उत्तरतः दक्षिणं यावत् सर्वे एव कोरोना इति वैश्विक आपदया द्ष्प्रभाविताआसन् इदानीं च महामार्या उन्मूलनाय सकलं अपि जगत् प्रति दधं वर्तते

समेधमानानां प्रकरणानां कारणानि अवश्यं जेयानि तेनोक्तं यत् न्तन प्रकरणानां अन्वीक्षणाय आवश्यका पदक्षेपा उत्थापनीया श्रीमान् मोदी निरदिशत् यत् यथाशीघ्रं स्थिते नियन्त्रणाय त्वरितं निर्णायकस्य कार्याचरणस्य आवश्यकता अस्ति असौ समसूचयत् यत् विगते एक सप्ताहे एव देशस्य सप्तति प्रतिशत मितेभ्यः जनपदेभ्यः सार्ध शत प्रतिशतं महामार्या प्रकरणानि पृष्टिंगतानि असौ राज्यानां केन्द्र शासित प्रदेशानां च मुख्यमन्त्रिभि समं मन्त्रयति स्म

देशे साम्प्रतं यावत् सार्ध त्रि कोटि जनेभ्य कोरोना सूच्यौषधानि प्रदत्तानि स्वास्थ्यमन्त्रालयेन ज्ञापितं यत् भूयोपि षट् सहस्राधिक पंचसप्तति लक्षेभ्य स्वास्थ्यकर्मिभ्य प्रथमतया सुच्यौषधानि प्रदत्तानि सम्प्रति देशे स्वस्थता मिति प्रवध्य प्रतिशतं षण्णवति दशमलव पंच षणमिता संजाता अस्ति

अवधेयमस्ति यत् राज्ये त्रिष् चरणेष् निर्वाचनानि भविष्यन्ति तत्र प्रथमे चरणे सप्त चत्वारिंशत् विधानसभाया संसदीय क्षेत्रेभ्य मतदानं विधास्यते एतदर्थ च प्रवर्तमानमासस्य सप्तविंशतिदिनांक निर्धारित अस्ति अपरत्र तमिलनाडो विधानसभा निर्वाचनेभ्य भाजपादलेन प्रत्याशि त्रय यूता अन्तिमा सूचि अद्य प्रकाशिता ध्येयं यत् भारतीय जनता पार्टीति दलं राज्ये विंशति आसनेष् स्पर्धते एतदतिरिच्य केरले अपि विधानसभा निर्वाचनानि आलक्ष्य प्रचाराभियानं तीव्रीभूतम् नामांकन प्रक्रियाया समापनं श्क्रवासरे भविष्यति तत्रैव निर्वाचनायोगेन कोरोनाकाले अस्मिन् शान्तिपूर्ण व्यवस्थितं च मतदानं आयोजयित् ं सर्वविधा आवश्यका उपाया प्रकल्पिता सन्ति

एतेष् नदीजला टन प्रदूषणन्यूनीकरण नदीतटस्रक्षा प्लवप्र न्धन नदीप्र न्धनै सहिता विषया सम्मिलिताः सन्तित ांग्लादेशे भारतीय उच्चायोगस्य विजप्तौ उक्तमस्ति यत् संयुक्त प्राविधिक समूह अस्मिन् सन्दर्भे परामर्श प्रदास्यति संयुक्त नदी आयोगस्य अन्तर्गत भारत ांग्लादेशयो जलसंसाधनानां सचिवस्तरीयं सम्मेलनं हय नवदिल्ल्यां जातम् भारतीय प्रतिनिधिमण्डलस्य नेतृत्वं जलसंसाधन नदीविकास गंगाप्नरूद्धारविभागस्य सचिव पंकजक्मार अकरोत्

इदं स्वकीयं प्रतिवेदनं मासान्ते प्रदास्यति अस्मिन दले निर्वाचनायोगस्य दवारा चत्वार सदस्या नियोजिता एतत् अद्य लोकसभायां विधिन्यायमन्त्री रविशंकरप्रसाद एकस्मिन् लिखितोत्तरे अवदत् मण्डीसांसद मृत्यु हिमाचलप्रदेशस्य मण्डीत भारतीय जनता पार्टीति दलस्य सांसद रामस्वरूप शर्मानवदेहल्यां स्वावासे मृतः सम्प्राप्त आरक्षिण आत्महत्याया प्रकरणस्यअन्वेषणं क्र्वन्त सन्ति दविषष्टिवर्षदेशीय दिवंगत नेता स्वप्रकोष्ठे मृत सम्प्राप्त भाजपादलेन अद्य शर्मण मत्यूसूचनानन्तरं संसदीय समिते सम्मेलनं निरस्तीकृतम् प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् ट्वीटलेखे स्वकीया संवदेना स्प्रकटितवान् गृहमन्त्रिणा अमितशाहेन अपि रामस्वरूप शर्मण अकालमृत्योउपरि शोक प्रकटित

स कोरोणा महामार्या पीडित आसीत् तथा च देहल्यां एकस्मिन् निजी चिकित्सालये उपचाराधीन आसीत् श्रीमान् गान्धी नवषष्टिवर्षदेशीयः आसीत् प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्री अमितशाह च स्वसंवेदना प्रकटितवन्तौ

देशे सूच्यौषध पर्याप्तताया निरीक्षणं निरन्तरं समित्या क्रियते विदेशमन्त्री डॉ एस् जयशंकर उभयो सदनयो वैक्सीनमैत्री सन्दर्भे उक्तवक्तव्यं प्राकाशयत् वैक्सीनमैत्री इति प्रकल्पजनकेन्द्रितनीते उदाहणमस्ति अनेन सम्पूर्णे विषये ज्ञातं भवेत् यत् भारतं स्वार्थं विहाय सम्प्र्ण विश्वस्य मंगलाय कार्य करोति

विगते वर्ष अस्मिन् एव अवधौ विहितस्य क्रयणस्य अपेक्षया प्राय चत्र्श प्रतिशतादपि अधिकस्य क्रयणं विहितम् आसीत् ध्यातव्यमस्ति यत् अस्मिन् वर्षे विहितेन खरीफ क्रयणेन नवनवतिलक्षत अपि अधिका कृषका लाभान्विता जाता

यतोहि उक्तं दलद्वयम्केरले निर्वाचननीति विषये परस्परं विरोधं प्रदर्शयति एकस्मिन् ट्वीट लेखे वरिष्ठभापजपानेता केन्द्रीय मन्त्री च प्रकाश जावडेकर केरलमुख्यमन्त्रिण पिनारैविजयनस्य कांग्रेसे कस्यचित् विश्वास नास्ति इति टिप्पणीम् उददिश्य अलिखत् उभयो नीति परस्परं विरोधयक्ता अस्ति क्रिकेट महिलाक्रिकेट प्रतियोगिताया अन्तिमायाम् एकदिवसीय प्रतिस्पर्धायां लखनौ नगरे दक्षिण अफ्रीकादलेन भारतीय दलं पराजितम् भारतदवारा स्थापितस्य नवाशीत्यधिक शतस्य धावनांकानां लक्ष्यं दक्षिण अफ्रीका दलेन सारल्येन अधिगतम् इति वार्ता